उन्नाव दृष्कर्मे संलिप्त उत्तस्प्रदेशस्य भाजपा विधायक कृलदीप सेंगर भाजपादलेन दलान्निष्कासित राष्ट्रमेकं एका च राशन कार्ड परा योजना चतुर्ष् राज्येष् प्रवर्तिता औपचारिक रूपेण उन्नावे दष्कर्म प्रकरणम् उन्नाव दृष्कर्म सम्बद्धे पञ्जीकृतानि पञ्च प्रकरणानि उच्चतम न्यायालयेन दिल्लीन्यायालयं प्रति स्थानान्तरितानि सहैव शीर्षन्यायालयेन उत्तरप्रदेश प्रशासनं पीडिताया सौविध्यर्थं पञ्चविंशतिलक्ष राशि प्रदानराय अपि समादिष्टम् अपरत्र प्रकरणे रविवासरे द्रापादिताय मार्ग दर्घटना प्रकरणान्वीक्षणाय केन्द्रीयान्वेषणदलं शीर्षन्यायालयेन सप्तदिनानि प्रदत्तानि अस्यां दूर्घटनायां पीडिता तद्वाक्कीलश्च क्षतिग्रस्तौ यद्यपि पीडिताया सम्बन्धिद्वयं मृत्युमुपगतमासीत् निर्णयोऽयं प्रधानन्यायाधीशेन न्यायमूर्ति रंजनगोगोईवर्यस्याध्यक्षयुतेन खण्डपीठेनाद्य श्रावित अपरत्र दृष्कर्मे संलिप्त उत्तरप्रदेशस्य भाजपा विधायक क्लदीप सेंगर भाजपादलेन दलान्निष्कासित प्रकरणे अन्येऽपि उत्तरप्रदेशस्य त्रय आरक्षिण कार्यावधौ कृतशैथिल्य कारणाय निलम्बिता प्रि पीडिताया सुरक्षायै आसन् नियुक्ता नैशनल कॉन्फ्रेंस प्रधानमन्त्री नैशनल कॉन्फ्रेंस दलस्य प्रमुख जम्मूकश्मीरस्य पूर्व मुख्यमन्त्री च फारूख अब्दुल्ला तच्छिष्टमण्डसहित राज्यस्थितिं परिचर्चित् प्रधानमन्त्रिणं नरेन्द्रमोदिनं अद्य समाह्वयत् शिष्टमण्डले तत्पत्र पूर्वमुख्यमन्त्री उमर अब्दुल्लापि अवर्तता वार्ताभिकरणान् सम्बोधयन् उमर अब्दुल्ला प्रावोचत् यत् राज्ये विधिव्यवस्था स्थापनमधिकृत्य शिष्टमण्डलेन प्रधानमन्त्री मन्त्रणार्थं अध्यर्थितम् सहैव शीघ्रातिशीघ्रं राज्ये विधानसभा निर्वाचनमपि कारयित्ं प्रोदीरितम्

तेलंगाना आन्ध्रप्रदेश महाराष्ट्र ग्जरातेति राज्येष् अद्य प्रभृति प्रायोगिक योजनान्ग्णं प्रकल्पितैषा योजना एतेन खाद्य स्रक्षा पत्र धारका सम्प्रति तद्राज्येष् न्यूनातिन्यूनमूल्येषु एव तण्डुलं गोधूमं च शक्नुवन्ति क्रेतुम्

प्रकरणमिद एयरसेल मैक्सिस क्रये विदेशी निवेश संवर्द्धन मण्डलानुमोदने कथित नियमोल्लंघन परं वर्तते

अभियानस्य महत्साफल्यं वर्तते आविश्वे प्रेरणाप्रदम् प्रधानमन्त्रिणा स्वीये मन की बात कार्यक्रमे स्वच्छताया महत्वमुदीरितोक्तं यत् राष्ट्रपितः महात्मगान्धिन स्वप्नं साक्षात्कर्त् प्रारब्धाभियाने सर्वैरपि सहयोगित्वेन भाव्यम् कार्यक्रमे ग्रामीणानां नगरवासिनां च संवर्धित सहभागित्वममुना प्रशंसितम्

एतादृक् पदक्षेप लोकसभाप्रवक्तु सर्वैरपि सांसदै प्रशंसित अत्रान्तरे ओम बिड़ला प्रावोचत् यत् निम्नसदनं त्रीऽपि सुव्यवस्थापयितुं नैके पदक्रमान् असौ समारप्यते यद्यपि सांसद कोऽपि कर्गद समीहते चेत् प्रापयिष्यति असौ क्रितदपि लोकसभा प्रवक्ता समाश्वासयत् नागालैण्ड कोहिमा कोहिमास्थे राजभवने आरएन रवि नागालैण्डस्य राज्यपाल पदभाराय प्रतिज्ञापित उच्चन्यायालये कार्यरतेन प्रवर्तमान न्यायाधीशेन अरूप कुमार गोस्वामी वर्येणासौ शपथवचनानि अंगीकारितानि